प्रधानमन्त्री नरेन्द्रमोदी श्व जन औषधि दिवस कार्यक्रमषे नवदिल्ल्यां दृश्य श्रव्य सम्भाषणेन भागं ग्रहीष्यति

संसद सदनयो कार्यजातं मार्च एकादशं यावत् रंगोत्सव अवकाशेभ्य स्थगितम् कोरोना प्रशासनं नोवल कोराना विषाण् रोद्ध ं समीक्षा विदधाति स्वास्थ्य मन्त्रालये विशिष्ट सचिवेन संजीव क्मारेणोक्तं यत् अद्य स्वास्थ्य सचिवया प्रीति सूदन वर्यया कोविड नवदश इत्यस्मत्तिष्ट्रिय स्तरस्य प्रशिक्षण कार्यक्रमस्य अध्यक्षता कृता तत्र सर्वेषा राज्यानां चिकित्सालयीय रेलविभागीय रक्षा अर्ध सस्त्र बलानां स्वास्थ्य अधिकारिभि भागं गृहीतम् श्रीसंजीवेनोक्त यत् विदेशेभ्य प्रत्यागत यात्रिणां अनिवार्य सुरक्षा प्रचलति कोरोना विषाणो अन्वीक्षणं नव अतिरिक्तेष् विमानपत्तनेष् प्रारब्धम् तेनोक्त यत् भारतदेशे एतस्य संख्या एकत्रिंशत् सञ्जाता

अद्य मुम्बय्याम् उद्योग जगत एकस्मिन् कार्यक्रमे तेन विश्वास प्रकटित यत् एतस्य प्रभाव सीमितो भविष्यति यतो हि देशस्य अर्थव्यवस्था वश्विक मूल्य श्रृंखलाया सम्पृक्ता नास्ति कोरोना ट्रम्प अमेरिकाया राष्ट्रपतिना डॉनाल्ड ट्रम्पेण कोरोना विषाणो संक्रमण सम्मुखीकर्त् सहायतार्थं अष्ट अर्बद त्रिंशत् कोटि डॉलर विधायी उपायेष् हस्ताक्षरं विहितम् एतस्मात् सार्वजनिक स्वास्थ्य अभिकरणेभ्य औषधि परीक्षण सम्भावित उपचाराय च राशि उपलब्धा भविष्यति

रामबन जनपदे गत रात्रौ श्रीनगरात् जम्मूं गम्यमानं कारयानमेक चेनाब नद्यां मगनम्

पाषाण विपतनात् भू स्खलनाच्च पञ्चशताधिकानि वाहनानि राजमार्गे अवरूद्धानि सन्ति

तेनाश्वासनं दत्तं यत् लेखागार धारकाणां धनं सुरक्षितं वर्तते तेनाद्य नवदिल्ल्यां प्रोक्तं यत् प्रशासनं रिजर्व बैंक च मिलित्वा सर्वसम्भव समाधानाय कार्यमाचरन्ति तेनोक्तं यत् येस बैंक उपभोक्तृणां हितानां सुरक्षा भविष्यति संसद संसद सदनयो कार्यजातं मार्च एकादशं यावत् होली उत्सवस्य अवकाशाय स्थगितं जातम् दिल्ली हिंसामालक्ष्य सद्य चर्चाभ्याचनामाधित्य विपक्षस्य कोलाहल कारणात् राज्यसभाया कार्यजातम् अद्य पञ्चमे दिवसेऽपि स्थगितं जातम् सदनस्य कार्यजातं यदा प्रारब्ध तदा विपक्षि सदस्य सदनमध्ये समागत्य सघोषा उच्चारिता